सूचनाप्रसारणमन्त्रिणा प्रोक्तं यत् विश्वसनीयता द्रदर्शनस्य परिचय

प्रधानमन्त्री अमेरीका अमेरिकीय राष्ट्रपति डॉनाल्ड ट्रम्प मासेड़स्मिन् दवाविंशति तारिकायां ह्यूस्टन नगरे प्रधानमन्त्रिण नरेन्द्रमोदिन जनसभायां सहभागं करिष्यति प्रधानमन्त्रिणा नरेन्द्रमोदिनोक्तं यत् कार्यक्रमे राष्ट्रपते डॉनाल्ड ट्रम्पस्य देशदवयमध्ये पारस्परिक सम्बन्धानां स्दृढीकरणं भारतीय सहभाग समुदायस्य अमेरिकीय समाजस्य च अर्थव्यवस्थायां योगदानं प्रदर्शयति एतदर्थ पंचाशत् सहस्राधिका देशद्वयस्य जना पंजीकरणं कृतवन्त हाउडी साझा सपने उज्ज्वल भविष्य नामाधारित कार्यक्रमोज्यं मोदी ह्यूस्टने एनआरजी प्रांगणे आयोक्ष्यते प्रधानमन्त्री श्रीनरेन्द्रमोदी राष्ट्रपतिना डॉनाल्ड ट्रम्पेण सार्ध डेमोक्रेटिक दलस्य वरिष्ठ सांसदः स्टेनी होयेर अपि जनसभायां सहभागी भविष्यति

तत्र पाकिस्तानस्य कोजपि अधिकारो न वर्तते लन्दन नगरे कश्मीर पण्डितानाम् एकस्मिन् कार्यक्रमे तेनोदीरितं यत् कश्मीरे भारतस्य अधिकारो वर्तते उत्तरीय लन्दन नगरे कंर्जेवेटिव दलस्य सांसदेन कश्मीरे सप्तत्य्तत्तर त्रिशत संख्याकस्य अन्च्छेदस्य अपाकरणे प्रबलं समर्थनं विहितम् तेनोदीरितं यत् यप्रधानमन्त्रिणा नरेन्द्रमोदिना जम्मू कश्मीर राज्यं भारतीय संविधानस्य अन्तर्गतं समावेश्य सुदृढ भारतस्य परिचय प्रदत्त सर्वोच्चन्यायालय कश्मीरम् सर्वोच्च न्यायालयेन कश्मीरे यथाशीघ्रं समान्यस्थितिम् आपादयित् सर्वसम्भवोपायान् प्रवर्तयित् केन्द्र प्रदशासनं विनिर्दिष्टम् प्रधान न्यायाधीशस्य न्यायमूर्ते रंजनगोगोईवर्यस्य न्यायमूर्ते एसएबोबड़े वरस्य न्यायमूर्ते एसएनजीरस्य च पीठेन प्रोक्तं यत् कश्मीरोपत्यकायां तथाकथित कर्म विराम विषये जम्मू कश्मीरोच्च न्यायालयेन स्वीय निर्णय श्रावयित्ं शक्ष्यते

दूरदर्शनम् सूचना प्रसारणमन्त्रिणा प्रकाश जावड़ेकरेणोक्तं यत् देशे अनेका वार्ता प्रणाल्य वर्तन्ते परं जना विश्वसनीय वार्तानां कृते द्रदर्शनं पश्यन्ति तेनोदीरितं यत् द्रदर्शनं सम्यक् सत्यसूचनाधारित वार्ताणां प्रसारणं करोति

तत्र अशेष राज्यस्य षड्जनपदानां त्रिशताधिकग्रामा जलाप्लवेन प्रभाविता सन्ति